तत्र राज्यश्राजपा नही दक्कि फड़णवीसस्य मुख्यमन्त्रित्वक्त राष्ट्रवादि कांग्रस्तिनही अजित पवारस्य च उप मुख्यमन्त्रित्व ्रापथ ग्रहणं विरुध्य उक्तया दलत्रय संयुत्या गतदिवस प्रिस्तता याचिकामधिकृत्य न्यायालया स्वीयो निर्णय अद्य यावत् सुरक्षित आसीत्

एतच्चरणाथं नामाङ्कन पत्र प्रप्रण कार्यं गतदिना संपन्नम् प्रत्याशिन गुरुवासरं यावत् स्व नाम प्रत्यावर्तयित् शक्नवन्ति

अत्रान्तर् तत्तत् क्षेप्रथम चरणार्थं नैर्वाचनिक प्रचारा परां काष्ठां भजन्त प्रथम चरण निर्वाचनानि च मासस्यास्य त्रिंश दिनाइक श्रिविष्यन्ति

युगलवर्गे भारतस्य अतन् दास दीपिका कुमारीभ्यां षड् द्वाइति लक्ष्यवधिन्तरालधि यिकहाई झेंग शाक्स्आन वई इत्यक्ति चीनदधीयं क्रीडक य्गलं पराजितम्